अद्य आविश्वे च गुरु नानक जयन्त्युत्सवः धार्मिक हर्षोल्लासेन परिपाल्यते भारतम् अद्य दृश्यश्रव्यप्रणाल्या शंघाई सहयोग परिषदः प्रम्खाना सम्मेलनस्य अध्यक्षता करिष्यति

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य संकल्पं स्वीकुर्वन्तु मुखावरंक सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु मन की बात प्रधानमन्त्रिणा श्री नरेन्द्रमोदिना प्रतिपादितं यत् अचिरमेव विहितै कृषिपरिष्कारै कृषकेभ्यो नूतनानि सम्भावना द्वाराणि समुद्घाटितनि सन्ति इति ह्यः पूर्वाहे एकादश वादने स्वीये मन की बात इति कार्यक्रमे भाषमाणो नरेन्द्र मोदी अव्रवीत् यत् कृषका सुदीर्घकालात् अस्मै परिष्काराय प्रतीक्ष्यमाणा आसन् एतत् प्रशासनेन हि परिष्कारोऽयं सम्प्रित प्रधानमन्त्रिणा स्पष्टीकृतं यत् संसदि बृहन्मात्रायां विचार विमर्शानन्तरं कृषि परिष्कारा इमे विधिरूपेण सवृत्ता एतै परिष्कारै न केवलं कृषका बन्धनै विमुक्तीक्रियन्ते अपित् तेभ्यो नृतनाधिकारा अवसराश्चापि प्रदीयन्ते इति प्रधानमन्त्रिणा युवान प्रार्थिता यत् ते निकटवर्ति कृषकान् कृषीक्षेत्रीय नवाचार विषये अपि च अचिरमेव विहिते कृषि परिष्कार विषये च जागरूकतया बोधयेयू इति